प्रधानमन्त्रिणा नरेन्द्रमोदिनोक्तं यत् डिजिटल इंडिया योजनात भ्रष्टाचार अपचित निर्धनजना च सेवाया लाभान्विता सब्जाता वस्त् सेवा करस्य द्वितीय वर्षपूर्वे अद्य प्रभृति प्रयोगाधारे नूतन प्रत्यागमन व्यवस्था प्रारब्धा पवित्र अमरनाथ यात्रा जम्मूकश्मीरे पहलगाम बालताल मार्गयो अद्य प्रभृति प्रारब्धास्ति जम्मू कश्मीर जम्मूकश्मीरे किश्तवाड जनपदे सब्जात बस दर्घटनायां मृतकानां संख्या पब्चत्रिशत् सब्जातास्ति सप्तदश जनाश्च गंभीरतया आहता सन्ति उपायुक्त अंग्रेज सिंह राणा प्रोक्तवान् यत् दुर्घटना एषा अद्य प्रात महत् गर्ते पतन कारणात् सञ्जाता तत्र साहाय्योद्धार कार्याणि प्रचलन्ति राज्यस्य राज्यपालेन सत्यपाल मलिकेन दुर्घटनायां मृतकेभ्य पञ्च पञ्च लक्ष रूप्यकात्मक अन्ग्रह राशि उद्घोषित दुर्घटनायां राष्ट्रपतिना रामनाथ कोविन्देन उपराष्ट्रपतिना वेंकैया नायड्ना प्रधानमन्त्रिणा नरेन्द्रमोदिना गृहमन्त्रिणा अमित शाहेन जम्म कश्मीर राज्यपालेन सत्यपाल मलिकेन प्रधानमन्त्री कार्यालये राज्यमन्त्रिणा डॉ जितेन्द्र सिंहेन अन्य नेतृभ्य च गंभीर शोक प्रकटित प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिनोक्तं यत् डिजिटल इंडिया कारणेन जना सशक्ता सब्जाता सन्ति एतस्मात् भ्रष्टाचारे प्रभावितया अवरोधनं स्थापितमस्ति निर्धन जनाश्च सेवाभ्य लाभान्विता सञ्जाता प्रधानमन्त्रिणा स्वीय ट्वीट सन्देशे प्रोक्तं यत् चत् वर्ष पूर्वे अद्यैव डिजिटल इंडिया योजना प्रारब्धा जाता आसीत् एतस्या उद्देश्यं प्रविध्या प्रयोग जनानाञ्कृते सुकरतया करणमस्ति जीएसटी प्रशासनं जी एस टी इति वस्त् सेवा कर प्रणाल्या द्वितीय वर्ष पूर्व्यवसरेऽद्य प्रभृति प्रयोगाधारे नूतन प्रत्यागमन व्यवस्था प्रारभति एषा व्यवस्था अक्तूबर प्रथम दिवसत अनिवार्यतया प्रभावि भविता वित्तमन्त्रालयेन प्रर्वत्तमान वित्त वर्षाय लघ् कर दातृभ्य सुकर सुगम प्रत्यागमन प्रणाल्या प्रस्ताव विहित प्रशासनं विंशति श्रेण्य पञ्च प्रमुख श्रेणिष् परिवर्त्य एकल धन प्रणाली अपि प्रारभति एषा प्रणाली कर ऋण शुल्क अन्य मदानां कृते एका एव प्रणाली भविता गत द्वि वर्षेषु प्रशासनेन एतस्यां व्यस्थायां भद्रतम परिष्कार कृत उपराष्ट्रपतिना एम वेंकैया नायड़नोक्तं यत् जी एस टी प्रभावि भृतानन्तरं भारतदेश अन्ताराष्ट्रिय कर मानकानां श्रेण्यां समागत पूर्व वित्तमन्त्रिणा अरूण जेटलिना जी एस टी प्रभावि भूतस्य वर्ष द्वयानन्तरं विंशति राज्यानां स्वीय राजस्वे चत्तर्दश प्रतिशत वृद्धि समाकलितास्ति एकस्मिन् वक्तव्ये अरूण जेटलिनोक्तं यत् गत द्वि वर्षेष् वस्त् सेवा कर दातृणां प्रतिशतं विवर्ध्य चत्रशीति सञ्जातमस्ति एतस्मात् व्यापारिण उपभोक्तार च लाभान्विता जाता अमरनाथ यात्रा वार्षिकी पवित्र अमरनाथ यात्रा अद्य प्रभृति बालताल पहलगाम मार्गयो अप्रेसत्तं प्रारब्धा अद्य प्रथम दिवसे द्वादश शत यात्रिण प्रथमदले पवित्र गुहाया दर्शनार्थं प्रस्थिता

राज्यपालेन सत्यपाल मलिकेन श्रीअमरनाथजी श्राइन मण्डलस्य अध्यक्षरूपेण प्रथम पजा अपि आचरिता यात्रैषा रक्षा बन्धन पर्वणि अगस्त पञ्चदशे समापयिष्यति

तत्र बहनि स्थलानि जलमग्नानि जातानि हिंदमाता दादर सायन सांताक्रज सदृश क्षेत्रेषु जलपूर कारणात् मार्गीय यातायातं प्रभावितं वर्तते रेलयानानि अपि तत्र विलम्बेन प्रचलन्ति